झारखण्डे महासंयुते नेता हेमन्तसोरेन रविवासरे मुख्यमन्त्रित्वेन शपथवचनं स्वीकरिष्यति

अटल भूजलयोजना पंचायतानां नेतृत्वे भूमि जल प्रबंधनं वर्धापथिष्यति अस्यां योजनायां षट् सहम्र कोटि रूप्यकणां निवेश भविष्यति

श्री वाजपेयी वारत्रयं भारतस्य प्रधानमंत्री पदे आरूढ़ आसीत् पञ्चदशाधिक द्विसहस्रतमे वर्षे श्रीवाजपेयी भरतस्य सर्वोच्च नागरिक सम्मानेन भारत रत्नेन विभूषित अद्य लखनऊ नगरे प्रधानमंत्री नरेन्द्रमोदी श्री वाजपेयी वर्यस्य कांस्य प्रतिमाया अनावरणं करिष्यति सममेव श्रीमोदी अटल बिहारी वाजपेयी चिकित्सा संस्थानस्यापि शिलान्यासं करिष्यति राष्ट्रमद्य स्वतन्त्रतासेनानिने भारत रत्न विभूषिताय मदनमोहन मालवीय वार्याय अपि तदीय जन्म जयन्त्यवसरे स्मारयति मन्त्रिमण्डलम् प्रधानमन्त्रिणो नरेन्द्र मोदिन अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन आगामि वर्षे राष्ट्रियजनसङ्ख्यापञ्जिकाया अद्यतनीकरणम् अनुमतम् मन्त्रिमण्डलस्य उपवेशनानन्तर् सूचना प्रसारण मन्त्री प्रकाश जावडेकर प्रावोचत् यत् जनगणनाया सरलतायै एप् इति चरिष्णुतन्त्रप्रणाल्या प्रयोगो विधास्यते स्पष्टीकृतं यत् जनगणनावधौ कस्यापि अभिलेखस्य प्रपत्रस्य चावश्यकता नैव भविष्यति

प्रातत्वकेन्द्राणि केन्द्रीयपर्यटनमन्त्री प्रह्नादसिंहपटेल प्रावोचत् यत् उत्तरप्रदेशे भारतीय प्रातत्वसर्वेक्षण विभागाधिकृतेष् पञ्च स्थलेष् चीनदेशीयभाषायां पटोल्लेखो विहित एतेष् सारनाथ चोखण्डी स्थित स्तूप कुशीनगरस्य महापरिनिर्वाणमन्दिरम् पीपरहवा श्रावस्ती च विद्यन्ते श्री पटेलेनोक्तं यत् वैदेशिकपर्यटकाणां सौविध्यं निध्याय भारतीय प्रातत्वसर्वेक्षणविभागेन महत्वपूर्ण प्रातात्विक स्थलेष् सर्वास् वैदेशिक भाषास् पटोल्लेखस्य निर्णय स्वीकृत झारखण्डे शपथग्रहणम् झारखण्डे महासंयुते नेता हेमन्तसोरेन रविवासरे मुख्यमन्त्रित्वेन शपथवचनं स्वीकरिष्यति राज्यपालेन द्रौपदी मूर्म वर्या सह मेलनानन्तरं गतरात्रौ रांची नगयाँ हेमन्तसोरेन प्रावोचत् यत् सहयोगिदलाभ्यां तस्य समर्थने पत्राणि राज्यपालसमक्षं प्रस्तुतानि

जनाना गृहाणि प्रभु ईसा मसीहस्य जन्मस्य स्थिर दृश्यै सुसजितानि सन्ति सुसज्जायां काष्ठस्य वस्त्राणां च प्रयोगो भवति क्रिसमस महोत्सव नव वर्ष पर्यन्तं भविष्यति

एकस्मिन् वक्तव्ये श्रीशाहेन प्रोक्तम् यत् राष्ट्रीय जनसंख्या पञ्जिकाया एकमपि विवरणं राष्ट्रीय नागरिकपञ्जिकायां नैव प्रयोक्ष्यते तेन एतदपि प्रोक्तम् यत् ये जना राष्ट्रीय जनसंख्यापव्जिकाया विषये भ्रान्ति प्रसारयन्ति ते निर्धनानां अल्पसंख्यकानां च हितेष् बाधाम् उत्पादयन्ति